एतस्मात् वित्तीयार्थव्यवस्था सुदृढयिष्यते

कार्जि व्यामालोकतान्त्रिक मोर्चादलप्र पाला विधानसभासनं विजितम् प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य सायं न्यूयॉर्कनगरे संय्क्त राष्ट्र महासभाया चत्स्सप्तति तमीयाधिवेशनं संबोधयिष्यति अधिवेशनमिदं सार्द्ध षड्वादनाद् प्रारप्स्यते श्रीमोदी रात्रौ अष्ट वादनात् नव वादन अन्तरे संत्रं सम्बोधयिष्यति इत्याशास्यते स्वीय सम्बोधने श्रीमोदी निर्धनतोन्मुलन सुलभ स्वास्थ्य आतंकवाद ऋत् परिवर्तन सम्बद्ध प्रकरणेष् तदीयप्रशासनेनोत्थापिता पदक्रमा चर्चिष्यन्ते

नेतृदवयेन दविपक्षीया सम्बन्धा दृढयित्ं परिचर्चिता क्षेत्रीय वैश्विक विकासमवलम्ब्य विचारा दान प्रदानमपि विहितम् आधिकारिकस्रोतसा विज्ञापितं यत् आविश्वे शान्तिसंधारणाय स्रक्षा संवाद विश्वास कूटनीतीत्यादिष् क्षेत्रेष् कार्याचरणं महत्वपूर्ण प्रतिपादितं प्रधानमन्त्रिणा

असौ जम्मूसंभागे रामबने दलस्य जन जागरण अभियानं संबोधयति स्म

ऐषमो वर्षे पर्यटनं वृत्यवसराश्च सर्वेभ्योज्वलम् भविष्यम् इति विषयमवलम्ब्य प्रथमं तावत् भारतं दिवसोयम् आमानयति अत्रावसरे उपराष्ट्रपतिना एम् वेंकैया नायड्ना अद्य नवदिल्यां राष्ट्रिय पर्यटन प्रस्कारा उपायनीक़ता

अन्तिमा तिथिश्च अक्तूबर चत्र्थी विद्यते महाराष्ट्रे अष्ट अशीत्युत्तर द्विशतासनानां कृते हरियाणायां च नवति आसनानां कृते अक्तूबर एकविंशे दिनांके मतदानानि आयोक्ष्यन्ते तदन् अक्तूबर चत्र्विंशे च मतगणना भविता मतगणना छत्तीसगढ उत्तरप्रदेश त्रिप्रायां च प्रत्येकस्मिन् एक विधानसभासनाय मतानां गणना प्रचलति छत्तीसगढे माओवाद प्रभावित दन्तेवाडा जनपदे उपनिर्वाचनानां मतगणना चापि

गंगा बागमती सोन गण्डक नद्य संकटचिहनमतिक्रम्य प्रवहंति राज्य प्रशासनेन हिम खण्ड स्थितिमालक्ष्य जना सुरक्षित स्थानं प्रति ग गन्तुं विनिर्दिष्टा

ऋतु विभागेन आगामि दिवसयो भीषण वृष्टे आशंका अभिव्यक्तास्ति